जम्मू कश्मीर जम्मू कश्मीरे सुरक्षाबलै सप्त आतंकवादिन व्यापादिता गतदिने अपराहे शोपियां क्षेत्रे पंच आतंकवादिन मारिता तदनन्तरम् अद्य प्रात् अपरस्यां हिंस्व घटनायां सम्मुखीकरणे द्रौ आतंकवादिनौ मारितौ एष् एक कुख्यात आतंकवादी इम्तियाज्ञ शाह अपि मारित य अंसार गजवत् उल हिन्द इत्यस्य आतंकवादि संघटनस्य प्रमुख आसीत्

स प्रोक्तवान् यत् संक्रमण प्रकरणेष् वृद्धि जनानां असावधानतया दरीदृश्यते अद्य मन्त्रिसमृहस्य चतुर्विंशतितमस्य उपवेशनस्य अध्यक्षतां क्वन् मन्त्रिणा आश्वस्तं यत् संक्रमणस्य प्रसारं रोद्वम् उपचाराय च सर्वे उपयुक्ता उपाया सौविध्यानि च उपलब्धानि सन्ति स संसुचितवान् यत् देशे पंचदशसहस्रात् अपि अधिका स्वास्थ्यसमृहा कार्यरणा सन्ति अपि च कोविड रोगिणां कृते अष्टादशलक्षदपि अधिका शय्या उपलब्ध सन्ति

अद्य नवदिल्ल्याम् एकस्मिन् वार्ताहर सम्मेलने तेन प्रोक्तं यत् साम्प्रतं यावत् रेलसेवाया निरस्तीकरणस्य सन्दर्भे महाराष्ट्र सर्वकारेण किमपि निवेदनं न प्राप्तम् स उक्तवान् यत् देशे यात्रिणां कृते रेलयानस्य अल्पता नास्ति

तेन प्रतिपादितं यत् कोविशील्ड कोवैक्सीन चेति द्वे अपि सुच्यौषधे समानरूपेण प्रभाविनी स्त असौ अद्य हैदराबादनगरं गांधी चिकित्सालयस्य सुच्यौषधकेन्द्रस्य निरीक्षणं कृतवान तदन्नतरं तेन प्रोक्तं यत् कोविड़ ऊनविंशति संक्रमणस्य प्रसारं रोढ़ जनै प्रशासनेन च मिलित्वा कार्यं करणीयम् सममेव तेन प्रतिपादितं यत् सूच्यौषधाभियाने सफलीकर्त् जनै सर्वात्मना प्रयतितव्यम् पश्चिम बंगाल निर्वाचनम् पश्चिम बंगाले विधानसभा निर्वाचनानां चतुर्थ चरणे उत्तरीय बंगालस्य कृच बिहार अलीपुरद्वार जनपदयो सुरक्षितं स्वतन्त्रं निष्पक्षं च मतदानं विधातूं सज्जता प्रवर्तन्ते अलीपुरद्वार जनपदे विधानसभाया पंचआसनानि कूचबिहारे च नव आसनानि सन्ति अत्र मतदानं श्व प्रात सप्तवदनात् सायं सार्धषटड़वादन पर्यन्तं प्रचलिष्यति कृचबिहार जनपदे सप्तति प्रत्याशिन अलीपरद्वार जनपदे च चत्वारिशत्संख्याका प्रत्याशिन सन्ति कोविड महामार्या संक्रमणं निध्याय निर्वाचन आयोगेन एकस्मिन मतदानकेन्द्रे केवलं साधैंक सहस्र मतदातृभ्य एव मतदानार्थम् अनुमति प्रदत्ता विराम संस्कृतवार्ताया संस्करणमिदं इदानीं आकाशवाणीत प्रसार्यते

केन्द्रीय स्वास्थ्यमन्द्रालय प्रत्यपादयत् यत् राष्ट्रे विगतास् चतुर्विंशतिहोरास् प्रायश एकनवति सहस्रोत्तर षट्रंत्रिंशत् लक्षमिता जना सूच्यौषधिं प्राप्तवन्त विगतास् चत्र्विंशतिहोरास् अष्टषष्ट्यधिक नवशतोत्तर एकत्रिंशत् सहस्राधिक एकलक्ष संख्याकानि नृतनानि कोरोणा विषाणो प्रकरणानि समक्षम् आगतानि अनेन सहैव देशे इदानीं यावत् संक्रमितानां कृलसंख्या समेध्य प्रायश त्रिंशत् लक्षाधिक एककोटि मिता संवृत्ता मन्त्रालयानुसारं विगते अहोरात्रे प्राय एकषष्टिसहस्रं जना संक्रमणात् विमुक्ता साम्प्रतं स्वस्थता प्रतिशतता एक नवत्युत्तर द्वि द्वि मिता अस्ति एतद् अतिरिच्य गते अहोरात्रे एव देशे अशीत्युत्तर सप्त शतं कोरोणा पीडिता प्राणान् अत्यजन् अधुनावधि देशे कोरोणा कारणात् मृत्युम् उपगतानां संख्या समेध्य सप्तषष्टि सहस्राधिक एकलक्ष संजातास्ति दशराज्येष् महाराष्ट्र छत्तीसगढ़ उत्तरप्रदेश दिल्ली कर्नाटक केरल मध्यप्रदेश तमिलनाड़ ग़जरात मिता राजस्थानेष् कोविड संक्रमण प्रकरणानि द्रतगत्या एधन्ते महाराष्ट्रे सर्वाधिकानि प्रकरणानि समक्षम् आगतानि अत्रान्तरे जवीयस्या गत्या महामार्या विवर्धमानं प्रकोपम् अभिलक्ष्य भारतीय चिकित्सा अनुसन्धान परिषद् अपि कोरोणा प्रारूप परीक्षण संख्याम् अनारतं समेधते राजनाथ कजाकिस्तान अद्य रक्षामन्त्री राजनाथ सिंह नवदिल्ल्यां कजाकिस्तान देशस्य सैन्याध्यक्षेन सह मन्त्रणोपवेशनं कृतवान् उपवेशने अस्मिन् द्वाभ्याम् अपि देशाभ्याम् विविधेषु क्षेत्रेषु पारस्परिक सम्बन्धात् दृढीकतृं विचारा प्रकटिता अस्मिन्नवसरे कजाकिस्तानदेशस्य रक्षामन्त्रिणा कजाक सैन्यदलं भारतीय सैन्यदलेन सह लेबनानस्थे संयुक्त राष्ट्र अन्तरिम बले कार्यकरणस्य अवसरं प्रदातूं रक्षामन्त्रिणं राजनाथसिंह प्रति धन्यवादा ज्ञापिता

अस्यां श्रृंखलायाम् अद्य प्रथमा स्पर्धा वर्तमान विजेतः मुम्बई इण्डियन्सदलस्य एवञ्च रॉयल चैलेंजर्सबैंगलौरदलस्य च मध्ये क्रीडिष्यते स्पर्धा सायं सार्धसप्तवादने समारब्धा भविष्यति